प्रधानमन्त्री मोदी श्व जन्तर्जालीयतन्त्रमाध्यमेन देशस्य विभिन्न दिग्भागेभ्य ग्जरातस्थं स्टैच् ऑफ य्निटि इत्याख्यं स्थलं प्रति रेलयानानि हरितध्वजप्रदर्शन प्रस्सरं गमनानुमतिं प्रदास्यते

देशे अस्मात् संक्रणात् प्रत्यवाप्निमिति पंच षड् दशमलवोत्तर षण्णवति प्रतिशतम् अंकिता गोवायाम् एकपंचाशत्तम भारतीयान्ताराष्ट्रिय चलचित्र महोत्सवत अस्ति समारब्ध

द्वितीय दिवसं यावत् भारतेन प्रथमे पर्याये क्रीडकद्वयस्य हानिपुरस्सरं द्विषष्टिर्धावनांका समर्जिता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपाद च यथासमयं प्रक्षालयन्त्

तेनोक्तं यत् प्राथमिकतया तेभ्य सुच्यौषधि प्रदीयते येष् संक्रमणस्य संभावना बलवती अस्ति आसंसारे बृहत्तमस्यास्य कार्यक्रमस्य उद्घाटनं प्रधानमंन्त्रिणा दश्य श्रव्य प्रणात्या आयोज्यमानायां संगोष्ठ्यां विहितम् अभियानस्थास्य प्रथमे चरणे कोटित्रयामिताजना द्वितीये च चरणे त्रिंशत् कोटिजना लाभान्विता भवितार विगतेभ्य नैकेभ्य मासेभ्य सुच्यौषधि निर्माणे निरतेभ्य वैज्ञानिकेभ्य प्रधानमंन्त्रिणा वर्षवनानि व्याहरन् गर्वस्योदयं विषय इत्यपि उक्तम् अस्मदेशीया इयं सूच्यौषधि अन्यदेशिकया सूच्यौषध्या कथममपि ग्णप्रभावदृष्ट्या न्यूना नास्ति केवलं मूल्यदृष्ट्या एवं न्यूनमूल्यात्मिका अस्ति

वैज्ञानिकै सम्यक् परीक्ष्य तुष्टी भूय च स्वीकृता इमा सूच्यौषधय

अध्ये मासैकस्य विरामो वर्तितव्यम् अप्रे श्री मोदिना भणितंयत् औषध्या सह दृढ़तया स्रक्षाया उपाया अपि पालनीया अस्मद्देश आत्मविश्वासेन सह आत्मनिर्भरतया अनया महामायी मुक्तित्वमधिगच्छति अस्मद्रातहिर न्यगादीत् सत् केन्द्रियस्वास्थ्यमन्त्रिणा डॉ हर्षवर्धनेनापि देहलीस्थाया अखिल भारतीय आयुर्विज्ञानसंस्थाया सूच्योषधकार्यक्रमे भागोग्रीत संस्थानस्यास्य निदेशक डॉ रणदीप गुलेरिया नीति आयोगस्य सदस्य डॉ विनोद पालश्च अवसरेदस्मिन् सूच्यौषधिं गृहीतवन्तौ

भाजपादलाध्यक्षेण जगत्प्रकाशेनापि दिवसोदयं ऐतिह्यत्वेन टंकिष्यति इत्य्क्तिना सह देशीयसर्वकारस्य वैज्ञानिकानां च प्रशंसा कृता

विगते अहोरात्रे सप्तसप्त्यधिक नवशतोत्तर षोडश सहससड् रव्याका रोगिण रोगान्मुक्ता अनेन सहैव देशो पन्चदशाधिक सप्तशतोत्तर नवसप्तति सहस्रोत्तरैक लक्ष्याधिकैक कोटि संख्यां यावत् प्रत्यवाप्तिमानाडको विवर्धित साम्प्रतं यावत् त्रयस्विंशदधिक एकादश सहस्रोत्तर द्विलक्ष्य संख्याका जना उपचर्यन्ते विगते अहोरात्रो प्राय पन्चदश सहस्रं कोरोना संक्रमण प्रकरणानि सन्ति पंजीकृतानि मृत्युमितिरपि चत्वारि चत्वारि दशमलवो तैरक प्रतिशतं यावत् न्यूनायते